भवन्तोऽपि अस्माभि सह सुरक्षाया उपायत्रयस्य सङ्कल्पं स्वीकुर्वन्तु मुखावरक सन्धारयन्त सामाजिकद्रतां परिपालयन्तु पाणिपाद च यथासमय प्रक्षालयन्त्

पंचदशाधिक द्विसहस्रतमवर्षानन्तरं एतत् पंचमम् उपवेशनम् आसीत् अस्मिन् अवसरे प्रधानमन्त्रिणा नरेन्द्रमोदिना प्रतिपादितं यत् भारतीय संस्कृतिः सदैव प्रकृतिमाध्यमेन जीवनशैलीं संयोजयति श्रीमता मोदिना कथितं यत् उभयोः देशयोः मध्ये सदभावपूर्णाः मैत्रीसम्बन्धाश्च सन्ति यो हि लोकतांत्रिकमूल्य स्वतन्त्रता बहुवाद नियमबद्ध अन्ताराष्ट्रिय व्यवस्थाधारिताः सन्ति पीएम जलवायु प्रधानमन्त्रिणा श्रीनरेन्द्रमोदिना प्रतिपादितं यत् जलवाय् परिवर्तनदिशि नीति विधिः आदेशक्रमैः साकं व्यवहारपरिवर्तनमपि महत्वपूर्णां भूमिकां निभालयति प्रधानमंत्री नरेन्द्रमोदी सेरावीक वैश्विकोर्जा पर्यावरण नेतृत्व पुरस्कारेण अपि सभाजितम् पीएम पीएलआई प्रधानमन्त्रिणा श्रीनरेन्द्रमोदिना देशनिर्मितोत्पादनाम अधिकप्रतिस्पर्धायतं स्वीकारयोग्यं च कर्तम एतेषां गृणवत्तायां परिष्काराथं बलं प्रदत्तम्

राजनाथसिंह सैन्यबलानि रक्षामन्त्रिणा राजनाथसिंहेन गतदिवसे प्रतिपादितं यत्र सीम्सु भारतस्य दुढ़ेच्छाशक्तिबलेन नैकेषां प्रकरणानां सकारात्मकं शान्तिपूर्णञ्च च समाधानं सम्प्राप्तम् श्रीमता सिंहेन प्रतिपादितं यत् भारतीयसैन्यबलानि भारतीयसीमप्रान्तानां सुरक्षायै पूर्णरुपेण प्रतिबद्धानि सन्ति श्रीराजनाथसिंहेन केवडियायां संयुक्तसैन्यस्तरीयवार्ताक्रमं परान्तर्जालीय माध्यमेन सम्बोधयता एते विचाराः प्रकटिताः पश्चिम बंगाल असम निर्वाचन पश्चिम बंगाल असम विधानसभानिर्वाचनयोः द्वितीयचरणसम्बद्धाः अधिसूचनाः निस्सारिताः सन्ति अधिसूचनाप्रकाशन सहैव राज्ययोः निर्वाचननामांकनप्रक्रिया समारब्धा

भारतेन सप्तक्रीडकहानिप्रस्सर चतुर्णवत्यत्तरद्विशत धावनाड्काः समर्जिताः